न्यायालयेन सम्बद्ध पक्षेभ्य लिखितविवरणं प्रस्तोत् दिवसत्रयस्य समय प्रदत्त

सम्प्रति निर्णय श्रावणं न्यायालयेन स्रक्षितमस्ति पञ्च न्यायाधीशानां न्यायपीठेन यस्य अध्यक्ष मुख्य न्यायाधीश रञ्जनगोगोई अवर्तत तेन चत्वार्रिशद्दिन पर्यन्तं विषयेऽस्मिन् वादश्रवणं कृत्वा अद्य वादश्रवणं सम्पूरितम् पीठेन सम्बद्धा पक्षा सन्दर्भेऽस्मिन् लिखितविवरणं त्रिदिनान्तरे एव प्रदातुमपि विनिर्दिष्टा सन्ति न्यायपीठे न्यायाधीश एस ए बोबडे डी वाई चन्द्रचूड अशोकभूषण एस ए नजीरश्च सम्मिलिता आसन् चिदम्बरम निगडनम् दिल्ल्यूच्च न्यायालयेन अद्य प्राक्तन वित्तमन्त्रिणं कांप्रेस नेतारं च पी चिदम्बरमं विरुध्य सूचना प्रख्यापिता प्रवर्तन निदेशालयेन आई एन एक्स सञ्चारमाध्यम धनशोधन प्रकरणे तिहाड कारागारे निबद्ध कांप्रेस नेता पी चिदम्बरम अद्य निगडित केन्द्रीयान्वीक्षणाभिकरणस्य त्रिसदस्यीयेन अन्वीक्षकदलेन अद्य धनशोधन रोधि अधिनियमान्तर्गतम् असौ निगडितोऽस्ति सप्तदशोत्तर द्वि सहम्र तमब्रें आई एन एक्स सञ्चार समवायार्थं वैदेशिक निवेश संवर्धन मण्डलस्य अनुमति प्रदान प्रसंगे कथित अनियमितता चरणानाम् अन्वीक्षणार्थं धनशोधन रोध्यभियानाधिनियमान्तर्गतं निदेशालयेन आपराधिकं प्रकरणं पञ्जीकारितम् आसीत्

संघर्षे एक भटश्चापि व्रणीभूतोऽस्ति तत्रत्येन आरक्षि महानिदेशकेन दिलबागसिंहेन आकाशवाणी संसूचिता यत् बिजबह्हडा क्षद्वस्थ्य पजालपोरा स्थले अद्य द्रापन्ने प्रतिसंघर्षे व्यापादितेष् आतंकवादिष् एक हिजब्ल म्जाहिदीन गुल्मस्य समादेष्टा नसीर चाडरू अपि अवर्तत

तृतीय आतंकवादी साम्प्रतमपि परिचीयमानो वर्तते श्रीसिंहेन भणितं यत् आतंकित्रयमपि विभिन्नेष् आतंकि कृत्येष् सम्मिलितम् आसीत् अम्नोक्त यत् व्रणितो भट उपचाराधीनो वर्तते

एतद्धि मानवाधिकारोल्लंघनस्य गम्भीरं प्रकरणम् आसीत् यत्र न केनापि ध्यानं प्रदत्तम् परन्त् सम्विधानस्य अस्थायि प्रावधानस्य अवसानानन्तरं विश्वस्मिनपि विश्वे मानवाधिकाराणां परिचर्चा वर्धते